श्रीमोदिना उक्तं यत् राज्याय विशिष्ट स्तर प्रदानात् अत्र केवलं पृथक्तावाद आतङ्कवाद परिवारवाद भ्रष्टाचारश्च संप्रवर्धिता

प्रधानमन्त्रीसम्बोधनम् प्रधानमन्त्री नरेन्द्र मोदी न्यगादीत् यत् सप्तत्यधिक त्रिशत संख्याकानुच्छेदस्य निरसनात् जम्मू कश्मीर लद्दाखयो निवासिनां कृते एकस्य अभिनवस्य युगस्य आरम्भोऽजायत गतसायं राष्ट्र संबोधयता प्रधानमन्त्रिणा प्रोक्तं यत राष्ट्ररूपेण अस्माकं देशेन एक ऐतिहासिको निर्णय विहित तेनोदीरितं यत् कदाचित् किञ्चित् तथ्यम् अपरिवर्तनीय प्रतिभाति एतस्य अन्च्छेदस्य विषयेऽपि एवमेव धारणा आसीत श्रीमोदिना उक्तं यत् राज्याय विशिष्ट स्तर प्रदानात् अत्र केवलं पृथक्तावाद आतङ्कवाद परिवारवाद भ्रष्टाचारश्व संप्रवर्धिता तेन उदीरितं यत् दशकेभ्य जम्मूकश्मीरे परिवारवाद पोषित प्रशासनात् अत्रत्या युवान वृत्ते मुख्यधारायाश्व पूर्णतो विच्छिन्ना श्रीमता मोदिना निगदितं यत् नृतन व्यवस्थायां केन्द्र शासनस्य इयं प्राथमिकता भविष्यति यत् देशस्य अन्य भागानां कर्मकरारक्षिबलवत् जम्मुकश्मीरस्य कर्मकरा आरक्षिणश्च समान सुविधा प्राप्न्यूरिति प्रधानमन्त्रिणा जम्मू कश्मीर वासिन समाश्वासिता यत् ते ईद पर्व कीदृष्विध काठिन्यं विनैव समुखं परिपालयितुं शक्नुवन्ति

एतेष् राज्येष् सम्प्रति जलाप्लाव स्थिति गंभीरा वर्तते

विदेश मन्त्रालयेन प्रतिपादितं यत् पाकिस्तानेन सम्बन्धानां विच्छेदे यानि करणानि प्रस्त्तानि तानि सत्यान्वितानि तथ्यपराणि च नैव सन्ति पाकिस्तानस्य अस्मिन् कृत्ये खेद प्रकाशयता मन्त्रालयेन पाकिस्तान स्व निर्णये पुन विचारार्थमनुरोधितम् उद्वोषणा आकाशवाण्या वार्ता सेवा प्रभागेन अद्य भारतं मुब्च इत्यान्दोलनस्य वार्षिक्या अवसरे द्विभाषिक एको विशिष्ट कार्यक्रम प्रस्तोष्यते आकाशवाण्या दिल्ली केन्द्रे समाहता विशिष्ट वक्तार जम्मू चण्डीगढ चेन्नई लखनऊ कोलकाता मुम्बईस्थेष् क्षेत्रीय केन्द्रेष् वर्तमानै विशेषज्ञै सम्भाषयिष्यन्ते एफ्एम्गोल्ड् वाहिन्या विशिष्टस्यास्य कार्यक्रमस्य प्रसारणं रात्रौ सार्ध नव वादनात् विधास्यते